प्रधानमन्त्री अर्थव्यवस्था प्रधानमन्त्री नरेन्द्रमोदी अय सबलं प्रत्यपादयत् यत् राष्ट्रिय जनतांत्रिक संयुति प्रशासनम् आगामि पञ्चवर्षेष् निवेशाधारितवृद्वयै शतलक्ष कोटिरूप्यकाणां निवेश लक्ष्यमधिगन्तुं प्रयतते आङ्ग्लभाषिक दैनिक पत्रेण सह साक्षात्कारे श्रीमोदी प्रावोचत् यत् प्रशासनेन क्षेत्रीयान्ताराष्ट्रिय स्रोतोभि निवेशसंवर्धनाय प्रभावपूर्ण नीतयः स्वीक्रियन्ते निगदितं च प्रशासनं भारतं व्यापाराय आकर्षणकेन्द्रत्वेन निर्मातुं सर्वविधा प्रयतमानं वर्तते सममेव प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् जम्मूकश्मीरात विशेषविधि निराकरण सम्बद्वनिर्णयो विचार विमर्शानन्तरं स्वीकृतः

राष्ट्रपतिना रामनाथकोविन्देन उपराष्ट्रपतिना एमवेंकैयानायड्रना प्रधानमन्त्रिणा नरेन्द्रमोदिना च देशवासिभ्यः ईद पर्वणः शुभकामनाः प्रदत्ताः जम्मूकश्मीरे अपि ईद पर्व शान्तिपूर्णरीत्या आमान्यते डोभाल कश्मीरोपत्यका राष्ट्रियसुरक्षापरामर्शदः अजीतडोभालः अद्य कश्मीरोपत्यकायां सुरक्षा स्थितेः समीक्षाम् अकरोत् तत्र स्थितिः सामान्या वर्तते जनाः ईद उल पर्व महतोल्लासेन परिपालयन्ति जावडेकर भोपाल सूचनाप्रसारणमन्त्री प्रकाशजावडेकरः अद्य मध्यप्रदेशस्य इन्दौरनगरे वार्ताहरान् सम्बोधयन् प्रावोचत् यत् सप्तत्यधिक त्रिशतान्च्छेदस्य अपाकरणं जम्मूकश्मीरनिवासिभ्यः न्यायोचितम् वर्तते सम्प्रति जम्मू कश्मीरनिवासिभिः देशस्य अन्यराज्यानि एव शिक्षादि क्षेत्रेषु आरक्षणादि सामान्याधिकाराः प्राप्स्यन्ते अपि चोक्तं यत् कांग्रेसदलेन पञ्चसप्तति दिवसेस् केवलं अध्यक्षपदस्य चयनं कृतं अपरत्र भाजपेति दलेन देशविकासाय पञ्चसप्ततिः निर्णयाः स्वीकृता युवपुरस्कार अन्ताराष्ट्रिय य्वदिवसावसरे नवदिल्ल्यां समायोजिते कार्यक्रमे खेलय्व प्रकरणानां मन्त्री किरेन रिजिज् अद्य विंशतिः युवभ्यः संघटनत्रयेभ्यश्च षोडशोत्तर द्विसहस्र सप्तदशोत्तरद्विसहस्र तम वर्षस्य राष्ट्रिययुव पुरस्कारान् व्यतरत् अत्रावसरे किरेन रिजिजू प्रावोचत् यत् अस्माकं विशाला युवशक्ति सम्भूय कार्याचरणेन राष्ट्रं शिखरमारोढ़ समर्था वर्तते भाजपा सदस्यता भारतस्य मल्लक्रीडिका बबीता फोगटः तस्य पिता महावीर फोगटश्च अद्य भाजपादलस्य सदस्यता स्वीकृतवन्तौ खेलय्वप्रकरणानां मन्त्री किरेन रिजिजू भाजपेतिदलस्य महासचिवः अनिलजैनश्च अत्रावसरे उपस्थितौ अवर्तताम् अनन्तरम् बबीता महावीरश्च भाजपेतिदलस्य कार्यवाहकाध्यक्षं जेपीनड्डा वर्यम् अमिलताम्

अमरनाथ साहनी राकेशसाहनी च आयुधानि समेत्य आत्मसमर्पणं कृतवन्तौ आरक्षिभिः प्रोक्तं यत् नियमान्सारेण डभयोः प्नर्वासो विधास्यते

अमूना इसरो इति भारतीयान्तरिक्षान्सन्धानसंघटनं समेत्य बृहत्संख्यायां संस्थानानि स्थापितानि आसन्